देशे स्वच्छ भारताऽभियान प्रवर्तनाय अद्य श्रीमोदिने बिल् मिलिण्डा फाउण्डेशन् पक्षतो विशिष्ट सम्मानः समर्पयिष्यते सम्प्रति नियुक्तेः सप्तवर्षाभ्यन्तरे यदि कस्यचित् शासकीयकर्मचारिणो निधनं भवति तर्हि तदीयपरिवाराय प्रतिशतं पञ्चाशन्मितं समेधित सेवोत्तरवेतन प्रदास्यते

सः गतदिवसे अमेरिकायाः न्यूयॉर्क नगरस्थयाः संयक्तराष्ट्रपरिषदा समायोजिते जलवाय परिवर्तन विषयके शिखरोपवेशने स्वीयोद्रारं प्रकटयति स्म

सः अवसरेऽस्मिन् परामृशत् यदेतस्मिन् जागरूकता प्रसाराय सर्वतो जनान्दोलन प्रवर्तन समपेक्षितमस्ति

अस्मदीयो वार्ताहरो विज्ञापयति यत् सोऽयं तृतीयोऽवसरः यदा श्रीमोदी प्रवर्तमानायां सप्ताहव्याप्यमेरिकीय यात्रायां ट्रम्पं मेलिष्यति अद्य दिवसस्य पश्चाद भागे प्रधानमन्त्री भारत प्रशान्त द्वीप नेतृणां मन्त्रणोपवेशने भागमादास्यति सः संयुक्त राष्ट्राय गान्धि सौरोद्यानमपि अद्योपहरिष्यति

प्रशासनम्सेवोत्तरवेतनम् सम्प्रति नियुक्तेः सप्तवर्षाभ्यन्तरे यदि कस्यचित् शासकीयकर्मचारिणो निधनं भवति तर्हि तदीयपरिवाराय प्रतिशतं पञ्चाशन्मितं समेधित सेवोत्तरवेतनं प्रदास्यते